दीक्षान्त प्रधानमन्त्री नरेन्द्र मोदी अद्य प्रातः दृश्य श्रव्य सम्मेलनस्य माध्यमेन पण्डित दीनदयाल पेट्रोलियम विश्वविद्यालयस्य अष्टमे दीक्षान्त समारोहे सम्बोधयिष्यति दीक्षान्त समारोहे प्रायः षट्शतोत्तर द्विसहस्रछात्रा डिग्री अथवा डिप्लोमा दीक्षां अधिगमिष्यन्ति

प्रधानमन्त्री व्यज्ञापयत् यत् जम्मूकश्मीरे सद्य एव व्यापादिताः चत्वारो आतंकिनः